कर्णाटके सद्यः शासनमधिरूढं भाजपा प्रशासनम् अद्य राज्य विधानसभायां शक्ति परीक्षणं सम्मुखीक्रुते अफगानिस्ताने काबुल नगर्यां ह्यो द्रापादितम् आतंकवाद्याक्रमण भारतेन भूरिशो भर्त्सितम्

राष्ट्रपति बेनिन् राष्ट्रपतिः श्रीरामनाथ कोविन्दः अद्य कोटोनौ नगर्यां बेनिन् देशस्य राष्ट्रपतिना पैट्रिस टालोन वर्येण समं सम्भाषिष्यते सः तत्र नगयाँ विगतापराह्ने सम्प्राप्तः सम्भाषणाऽनन्तरं नेतु द्वयेन देशद्वयमध्ये नैकानि सन्धि पत्राण्यपि हस्ताक्षरैः प्रमाणयिष्यन्ते अत्रेदं ध्यानास्पदं विद्यते यत् श्रीकोविन्दः एष् दिवसेष् पश्चिमाफ्रीकायाः बेनिन् गाम्बिया गिनी चेति त्रयाणां राष्ट्राणां यात्रा रतोऽस्ति

विगते शुक्रवासरे मुख्यमन्त्रि पदे पुनरेकदा प्रतिज्ञापितः भाजपा दलीयो वरिष्ठ नेता बीएस ेवियुरप्पा आशां प्राकाशयत् यत्तदीयं प्रशासनं सम्प्रति अष्टाधिक द्विशत सदस्यात्मिकायां विधानसभायाम अद्य अज्जसैव स्वीयं मत बाहुल्यं संसाधयिष्यति अत्रेदं ध्यानास्पदं विद्यते यद् विगते दिवसे तत्रत्य विधानसभाध्यक्षेण कांप्रेस दलस्य चतुर्दश ततः पूर्व च जेडीएस् दलस्य त्रयो विधायकाः अयोग्याः समुद घोषिताः आसन्

तदीयं पार्थिव शरीरम् अद्य पूर्वाह्ने सार्ध दश वादने हैदराबादस्थे गान्धि भवने जनानाम् अन्तिम श्रद्धाञ्जलये स्थापयिष्यते

आक्रमणेऽस्मिन् निहतानां निरपराधानाम् अफगानिस्तानीयानां परिवार जनान् प्रति हार्दिकीं सम वेदनां प्रकाशयता विदेश मन्त्रालयेन पुनर्विशदीकृतं यद् भारतं तत्र देशे शान्तिं सुरक्षां स्थैर्यं च प्रतिष्ठापयित्ं तत्रत्यैः जनैः प्रशासनेन च सार्धं सदा सदाढर्यम् समवस्थास्यते विश्वव्याघ्रदिवस अद्य अन्ता राष्ट्रिय व्याघ्र दिवसोऽस्ति